जम्मू सैन्यप्रवक्ता प्रावोचत् यत् विगत षड्रिंशत्होरास् पाकिस्तानमि कश्मीरोपत्यकायां शान्तिं अपाकर्त्म् अमरनाथयात्रां च द्वष्प्रभावयित् नैक ि प्रयासा विहिता

एवं प्राकरण विगत दिनद्वय जैश ए मोहम्मद ग्ल्मस्य चत्वार आतंकिन व्यापादिता प्रधानमंत्री प्रधानमंत्री नरद्विमोदी भाजपा दलस्य संसत्सदस्यान् अवोचत् यत् तक् मंत्री सांसद विधायकपदानि अवाप्य मूलतो सक्रिय कार्यकर्तृरूपण कार्य कुर्वन्तो इति नवदिल्लयां भाजपा संसत्सदस्यध्यी द्विदिवसीय प्रशिक्षणकार्यशालाया अभ्यासवर्गस्य उद्घाटनं विदधता श्रीमोदिनोक्तं यत् भाजपा दलं संघटितं वर्तत समम्र उक्तं यत् आयुचिन्तां विहाय विद्यार्थीवत् निरन्तर अध्ययनं क्वन्त् संसदीयकार्यमंन्त्री प्रह्नादजोशी प्रावोचत् यत् भाजपादलक्रिस्यापि पारिवारिक रिक्थं नास्ति अपि च विचारधारया दलक् वर्तमान स्थिति प्राप्ता राष्ट्रपति राष्ट्रपति रामनाथकोविंद अवोचत् यत् भारतगिनीदश्मिो पूरकशक्तिं दृष्ट्वा व्यापार निवर्णीक्षक्री दश्चियस्य द्विपक्षीयप्रगत्यै व्यवसाय असंख्यावसरा सन्ति गिनीद्रास्थ्य कोनाक्रीनगर भारतीयसमुदाय आयोजित स्वागतसमारोह राष्ट्रपतिना कोविन्द निगदितं यत् स्वास्थसंवर्धनाय इबोला रोगं विरुध्य युद्धं कृषि परिवहनं उर्जास्रक्षादि अस्माकं सहयोगस्य प्रम्खतत्वानि सन्ति जम्म रेल रल्विभाग निर्णीतं यत् जम्मू कटरा उधमप्र स्थानकध्यो प्रारप्स्यमाण यात्रायै आरक्षित यात्रापत्राणां निराकण श्ल्कं नैव स्वीकरिष्यति क्विलं निर्धारितयात्राशुल्कं एव स्वीकरिष्यत निर्णयोऽयं जम्मूकश्मीरात् अमरनाथयात्रिणां प्रत्यावर्तन सम्बद्ध प्रशासनिकादग्री निध्याय स्वीकृत

भारतस्य नवदीप सैनी भव्यप्रदर्शना स्पर्धा पुरूषत्वर्म प्रचित